कर्णाटकम् कर्णाटके काँप्रेस जेडीएस् दलयोः संयुति शासनं अल्पमत कारणान्निपतितम् राज्य मुख्यमन्त्रिणा एच्डीकुमार स्वामिना च स्व पद परित्यक्तम् ततःपूर्वं राज्य विधानसभायां परह्यो ह्यश्वानुवत्ते शक्ति परीक्षण क्रमे समाचरिते मताकलने शासनाधिरूढ दलस्य पक्षे नवतिः विपक्षिणो भाजपा दलस्य च पक्षे पञ्चाधिकानि शतं मतानि परिणामत्वेन प्रकाशमायातानि

पुलवामा श्रीनगरयोः सम्पादितेष् एष् निरीक्षणेष् केन्द्रीयाऽऽरक्षिताऽऽरक्षि बलानि जम्मू कश्मीरारक्षि बलानि चापि साहाय्यं व्यदधुः निरीक्षण क्रमे अधिगतेष् वस्तुष् नैकानि आंतकि साक्ष्याण्यपि अन्वीक्षण दलैः सम्प्राप्तानि

आरक्षि सूत्रैज्ञापितं यदिमे आंतकिनः तत्रैव श्रीनगरे चानपुरायां विशिष्टारक्ष्यधि कारिणो रोमानस्य हत्या प्रकरणे नैकेष् हस्तगोलक प्रक्षेपण प्रकरणेष् च संलिप्ताः अवर्तन्त पाकिस्तानम् विस्फोट पाकिस्तानस्य उत्तरीये बलूचिस्तान प्रान्ते ह्यो द्रापन्नायां भीषण विस्फोट घटनायां द्वौ जनौ मृतौ द्वा विंशतिश्व क्षताः संवृताः सूच्यन्ते तत्रत्येन आरक्ष्यूप महाधीक्षकेण विज्ञापितं यद्क्त प्रान्तस्य क्वेटा क्षेत्रे कस्यचिदौषधालयस्य बहिष्टात् स्थिते त्रिचक्रिका याने विस्फोट सामग्र्यः प्रच्छाद्य स्थापिताः आसन् आयकर प्रशासनेन वैयक्तिक स्तरे विगत वित्तवर्षयि आयकर परावृत्ति पत्राणां पूर्तये अन्तिमोऽवधिः मासावधये अप्रेसारितोऽस्ति

वित्त मन्त्रालयः स्पष्टमकरोत् यत् कतिपये कर दातारः आयकर परावृत्ति पत्राणां प्रपूर्तों विभिन्नैः कारणैः काठिन्यानि संमुखीकुर्वाणाः सन्तीति वृत्तमनुसृत्य प्रशासनेन एष निर्णयो गृहीतः